देशे सूच्यौषधाभियाने नूतनानि कीर्तिमानानि स्थापितानि देशे साम्प्रतं यावत् पंचाशत् लक्षोत्तरचत् कोटिजना सूच्यौषधं प्राप्न्वन्त

निर्वाचनोन्मुखेषु पश्चिमबंगाल असम सहितेषु राज्येषु आद्यस्य चरणद्वयस्य कृते विभिन्नानां राजनीतिकवृन्दानां नैर्वाचिकानि प्रचाराभियानानि सम्प्रति पराकाष्ठां प्राप्नुवन्ति

अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी श्व वर्षा जल संचय अभियानस्य दृश्यश्रव्यपरान्तर्जालीय माध्यमेन श्भारंभं विधास्यति अद्य अन्ताराष्ट्रिय विश्व वन दिवसो वर्तते अस्मिन् अवसरे पर्यावरण वन जलवाय् मंत्रिणा प्रकाशजावडेकरेण प्रतिपादितं यत् नूतना नागर वन योजना वनविस्तारे महत्वपूर्णां भूमिकां आवक्ष्यन्ति दिल्ली राज्ये अनुवर्तमानाया आईएसएफ इत्यस्या विश्वस्तरीय शूटिग चषक प्रतिस्पर्धाया अद्य तृतीय दिवस अस्ति

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सङ्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्तु

देशे सूच्यौषधाभियाने नूतनानि कीर्तिमानानि स्थापितानि देशे साम्प्रतं यावत् पंचाशत् लक्षोत्तरचतः कोटिजनाः सृच्यौषधं प्राप्न्वन्तः विगते अहोरात्रे चत्वारिशत् सहस्रोत्तर पंचविंशतिलक्षमितानि सृच्यौषधानि प्रदत्तानि अवधेयास्पदं वर्तते विश्वस्य वृहत्तम सूच्यौषधाभियानस्य प्रारम्भ देशे जनवरीमासस्य षोडशतम तारिकात अभूत् प्रथमचरणीय अभियाने प्रथम पंक्तिस्थितानां जनानां कृते अभियानं प्रारब्धम् आसीत् यत्र देशस्य स्वास्थ्यकर्मिण कोरोनामहामार्या सम्बद्ध प्राशासनिकजनाश्च सम्मिलिताः आसन् तदनन्तरं मासस्यास्य आरम्भे षष्टिवयोवर्गीयाणां गभीरव्याधिप्रपीडित पंचचत्वारिंशदधिवयोवर्गीयेभ्यश्च अभियानमिदं प्रारब्धमासीत् स्वास्थ्यमंत्रालयानुसारि देशे कोरोना महामारीत स्वस्थतामिति षट्नवदशमलवोत्तर पंचनवतिमिता जाता विगतास् चतुर्विंशतिहोरास् प्रायश त्रयोविंशतिसहस्रजना कोरोनात स्वस्थीभृता एवंच समाहत्य कोरोनासंक्रमणात् स्वस्थीभूतानां जनानां संख्या एकादशलक्षोत्तर एककोटिमिता संजाता एतदतिरिच्य विगते अहोरात्रे कोरोनासंक्रमणस्य चतृश्चत्वारिशत् सहस्रमितानि नृतनानि प्रकरणानि सम्प्राप्तानि स्वास्थ्यमंत्रालयेन संसृचितं यत् विगतास् चत्र्विंशतिहोरास् सप्तनवत्युत्तर द्विशतजना संक्रमणेनानेन मृत्युम्पगता सन्ति अथ च भारतीयायूर्विज्ञान संस्थानान्सारेण विगते दिवसे प्रायश त्रयस्त्रिंशदधिक एकादशलक्षमितानि परीक्षणानि चापि निष्पन्नानि संजातानि कोविड प्रकरण केन्द्र प्रशासनेन प्रोक्तं यत् कोरोना इत्यस्या विषाणो संक्रमणस्य सर्वाधिकानि प्रकरणानि षट्स् राज्येष् सन्ति

कुंभ मेला संघीय स्वास्थ्य मन्त्रालयस्य सचिव राजेश भूषण उत्तराखण्डस्य मुख्य सचिवं प्रति प्रबोधितवान् यत् राज्य कुम्भमेलायां कोरोना इत्यस्या संक्रमणं रोद्धू निर्धारितानां मानकानां परिपालनं समवधानता अति आवश्यकी वर्तते मन्त्रालयेन प्रोक्तं यत् द्वादश राज्येष् कोरोना संक्रमणस्य प्रकरणानि वर्धितानि दिव्यस्नानस्य दिनेष् एभ्य राज्येभ्य आगतै जनै संक्रमणेष् वृद्धि भवित् शक्यते प्रोक्तं यत् मेलाक्षेत्रे अपि प्रतिदिनं प्रायश द्वाविंशति जना संक्रमिता भवन्ति अतएव राज्ये स्थानीय जनानां तीर्थयात्रीणां च कोरोना संक्रमणस्य परीक्षणेष् बृहन्मात्रायामं वृद्धि क्र्यात् निर्वाचन अपडेट निर्वाचनोन्म्खेष् पथ्चिमबंगाल असम सहितेष् राज्येष् आद्यस्य चरणद्रयस्य कृते विभिन्नानां राजनीतिकवृन्दानां नैर्वाचिकानि प्रचाराभियानानि सम्प्रति पराकाष्ठां प्राप्न्वन्ति मार्चमासस्य सप्तविंशतितमेदिनांके प्रथमचरणीयम् अद्य च एप्रिलमासस्य प्रथमे दिनांके द्वितीयचरणं मतदानं सम्पत्स्यते अस्मिन्नेव क्रमे प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य मध्याहकाले बांकुराया तिलाबैद्याप्रांगणे एका जनसभा सम्बोधिता

अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्रमोदी श्व वर्षा जल संचय अभियानस्य दूश्यश्रव्यपरान्तर्जालीय माध्यमेन श्भारंभं विधास्यति प्रधानमंत्रिण उपस्थितौ जलशक्तिमंत्रिण अथ च उत्तरप्रदेश मध्यप्रदेश मुख्यमंत्रिणो मध्ये केन बेतववा सम्पर्क परियोजनाया क्रियान्वयन संबद्ध सन्धि प्रपत्रे अपि हस्ताक्षराणि करिष्यन्ते नदीनां सम्पर्कतामधिकृत्य राष्ट्रिययोजनान्तर्गतं इयं प्रथमा परियोजना भविष्यति वर्षाजलसंचय अभियानं अशेषे हि देशे ग्राम्य नगर क्षेत्रेषु प्रचालयिष्यते एत्कृते प्रचारीयवाक्यं भविष्यति यत्र पतेत् यदा च पतेत् तत् जलम् अवश्यमेव संचयेत् एतदभियानं श्व प्रभृति समारभ्य नवम्बरमासस्य त्रिंशत् दिनांकं यावत् प्रचलिष्यति

अस्मिन् अवसरे पर्यावरण वन जलवाय् मंत्रिणा प्रकाशजावडेकरेण प्रतिपादितं यत् नृतना नागर वन योजना वनविस्तारे महत्वपूर्णां भूमिकां आवक्ष्यन्ता एतदतिरिच्य जावडेकर प्रोक्तवान् यत् योजनया अनया नगरस्थानां ग्रामस्थानां च वनक्षेत्राणां समानरूपेण विकासो भविष्यति नागर वन योजनाया प्रथमे चरणे द्विशतनगरेष् नागर वनानि विकसिष्यन्ते अवधेयास्पदं यत् संयुक्तराष्ट्र महासभया द्वादशोत्तरविंशतितमे वर्षे एकविंशतितमे मार्चदिनांके अन्ताराष्ट्रिय वन दिवस समुद्वोषित आसीत् अथ च पर्यावरणमंत्रिणा अस्मिन् अवसरे जना निवेदिता यत् वनसंरक्षणाय जनाभियानानि प्रचलयेयु

अद्य भारतेन द्वे स्वर्ण पदके एकं रजत पदकं च समर्जितम्